श्रीमोदी अद्य ह्यस्टन् नगरे हाउडी मोदी कार्यक्रमे भारतीय समुदायं संबोधयिष्यति अवसरेऽस्मिन् अमेरिकीयो राष्ट्रपतिः डोनाल्ड ट्रम्पश्चापि तेन सहयोक्ष्यति महाराष्ट्र हरियाणयोः विधानसभा निर्वाचनानि ऑक्टोबर मासस्य एकविंशे दिनाड़के आयोजयिष्यन्ते

विश्वमल्लनायक स्पर्धामालिकायां भारतीयो मल्लः दीपकप्निया अद्य कजाकिस्तानस्य नुरसुल्ताने षडशीति किलोग्राम भारवर्गस्य निर्णायकचक्रे ईरानदेशीयं हसन याजदानिनं सम्मुखीकरिष्यति

यात्रायामेतस्यां द्यस्टने न्यूयॉर्के च श्रीमोदिनः विभिन्नाः कार्यक्रमाः सन्ति श्रीमोदी अद्य द्यस्टन नगरे हाउडी मोदी कार्यक्रमे भारतीय समृदाय संबोधयिष्यति अवसरेऽस्मिन अमेरिकीयो राष्ट्रपतिः डोनाल्ड ट्रम्पश्चापि तेन सहयोक्ष्यति

मतगणना आगामि मासीये चत्र्विशे दिनाड़के भविता नवदिल्ल्यां गतवासरे निर्वाचन कार्यक्रमम् उद्घोषयन् मुख्य निर्वाचनायुक्तः सुनील अरोड़ा प्रावोचत् यत् उभयोरपि राज्ययोः निर्वाचन प्रक्रिया ऑक्टोबर मासस्य सप्तविंशे दिनाइके पूर्णताम एष्यति अरोड़ा वर्येण निगदितं यत् नक्सल प्रभावितक्षेत्रेष विशिष्ट सुरक्षा प्रबन्धाः प्रकल्पिताः सन्ति महाराष्ट्रे अष्टाशीत्यधिक द्विशतासनेभ्यः हरियाणाराज्ये च नवत्यासनेभ्यो मतदानानि भवितारः उभयोरपि राज्ययोः तत्कालप्रभावेण नैर्वाचनिकी आचार संहिता प्रवर्तितास्ति अस्य मासस्य सप्तविंशे दिनाड़के निर्वाचनाधिसूचना प्रसारयिष्यते ऑक्टोबर् मासस्य चत्थों दिनाइकः नामाइकपत्रप्रप्रणाय अन्तिमो दिवसो भविता नामाइकनपत्राणां परीक्षणम् ऑक्टोबर् मासस्य पञ्चमे दिनाड़के भविता अपि च ऑक्टोबर् मासस्यैव सप्तमं दिनाड़क यावत् नामानि प्रत्यावर्तयितुं शक्ष्यन्ते मानवसंसाधनविकासमन्त्रालयः केन्द्रीयो मानव संसाधन विकास मन्त्री रमेश पोखरियाल निश्शङ्कः प्रावोचत् यत् प्रशासनेन राष्ट्रिय शिक्षा नीति निर्माणाय वृहत्पदक्षेपः प्रारब्धः अस्योदेश्ये ग्णयुक्तशिक्षया यूनाम् आकाङ्क्षापूर्तिः राष्ट्रस्य ज्ञानक्षेत्रे महाशक्तित्वेन प्रतिष्ठापनं च विद्यते रामविलास पासवान खाद्य प्रसंस्करणोपभोक्त प्रकरणाना मन्त्री रामविलासपासवानः प्रावोचत् यत् मन्त्रालयः मणिप्रराज्ये अनावृष्टि निध्याय राज्यशासनेन प्रस्तावित धान्यस्य न्यूनतमसमर्थनमूल्यं प्रवर्तयिष्यति

अस्मिन् चलचित्रे नायकः रणवीरसिंहः नायिका आलिया भट्टश्च आस्ताम्

मल्लस्पर्धा विश्वमल्लनायक स्पर्धामालिकायां भारतीयो मल्लः दीपकपूनिया अद्य कजाकिस्तानस्य नूरसुल्ताने षडशीति किलोप्राम भारवर्गस्य निर्णायकचक्रे ईरानदेशीय हसन याजदानिन सम्मुखीकरिष्यति